प्रशासनेन कोविड नवदश विषाण् संक्रमणं निध्याय अफगानिस्तान फिलीपीन्स मलेशियादि देशानां यात्रिणो भारतम् आगुन्तुं तत्कालप्रभावेण प्रतिबन्धिता

प्रधानमन्त्री कोरोना प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना कोरोना विषाणो विषये देशे जनचेतना प्रसारणार्थं संचारकर्मिणां भूमिका श्लाघिता अद्य संसदि भारतीय जनता पार्टीति दलस्य संसदीय दलस्य उपवेशनात् परम् संसदीय कार्यमन्त्री प्रह्लादजोशी पत्रकारान् अस्चयत् यत् प्रधानमन्त्रिणा सांसदाः सप्ताहान्ते निज निज संसदीय क्षेत्रेष् गत्वा कोरोना विषये जागरुकता कार्यक्रमायोजनार्थ प्रोक्ता सन्ति एतदर्थमम्ना संचारमाध्यमानां सहयोग स्वीकरणमपि परामृष्टम्

विश्वस्वास्थ्यसंघ भारतम् डब्ल्यूएचओ इति विश्व स्वास्थ्य संघटनेन प्रतिपादितं यत् कोविड नवदश विषाण् संक्रमण निर्मूलने भारतेन उत्थापिताः पादक्षेपाः श्लाघ्याः सन्ति नवदिल्ल्याम अदय संचार माध्यमै साकं सम्भाषमाण भारते विश्व स्वासथ्य संघटनस्य प्रतिनिधि हैंक बैकडम प्रत्यपादयत् यत् कोरोना संक्रमण नियन्त्रण विषये भारत प्रशासनस्य प्रतिबद्धता तदपि साक्षात् प्रधानमन्त्रि कार्यालयस्य संलग्नता अतिशय प्रभावकरी वर्तते

मन्त्रालयेन एतदपि प्ष्टीकृतं यद् भारते कोविड नवदश विषाण् संक्रमणेन महाराष्ट्रे तृतीयो मृत्यू जात प्रशासन परामर्श प्रशासनेन कोविड नवदश विषाण संक्रमणं निध्याय अतिरिक्त यात्रा परामर्श प्रख्याप्य अफगानिस्तान फिलीपीन्स मलेशियादि देशभ्य आगम्यमाना यात्रिण तत्कालप्रभावेण प्रतिबन्धिता

सर्वोच्च मध्यप्रदेश सर्वोच्च न्यायालयेन मध्यप्रदेश विधानसभायाम् अविलम्ब शक्ति परीक्षण विधानार्थ पर्वमख्यामन्त्रिणा शिवराजसिंह चौहानेन प्रस्तुत याचिका विषये कमलनाथ प्रशासनं श्व सार्ध दश वादनं यावत् उत्तरं याचितमस्ति न्यायमूर्ते डी वाई चन्द्रच्ड़स्य अध्यक्षताय्तेन खण्डपीठेन प्रोक्तं यत् विधानसभा सचिवेन समेतेभ्य राज्यसर्वकाराय तत्सम्बद्धान्येभ्यश्च एतदविषये सुचना प्रख्यापितास्ति

न्यायमूर्ते डी वाई चन्द्रच्ड़स्य आध्यक्ष्यय्तेन पीठेन प्रोक्तं यत् देशस्य सेवा कृतवर्तीभ्य महिलाधिकारिणीभ्य स्थायि आयोगस्य अप्रदानं न्यायसिद्धान्तानां गम्भीरावहेलना भविष्यति